देशे साम्प्रतं यावत त्रिषष्टिस्राधिक विंशति लक्षोत्तरचत्ःकोटिजनेभ्यः सूच्यौषधानि प्रदत्तानि

नेपालेन भारतनिर्मित को वैक्सीन सूच्यौषधस्य आपद्गोपयोगार्थम अन्मति प्रदत्ता भारत इंग्लैण्डयो मध्ये अन्वर्तमानाया विंशति प्रतिविंशति क्षेप चक्रीयाया क्रिकेट क्रीडाश्रंखलाया पञ्चमी निर्णायिकी च स्पर्धा अद्य अहमदाबादे नरेन्द्रमोदिक्रीडांगणे समायोजयिष्यते

राजनाथ ऑस्टिन भारत अमेरिकादेशयोर्मध्ये वैश्विक सामरिक सहयोगस्य निखिलक्षमतानां प्रयोगार्थ सहमति जाता अमेरीकीयरक्षामन्त्रिणा लॉयड ऑस्टिनेन सह वार्ताया परं संयुक्तवार्ताहरसम्मेलने रक्षामन्त्रिणा राजनाथसिंहेन प्रोक्तं यतः इदं भारतस्य सागरनीत्यन्रुपं वर्तते यतः तटीयक्षेत्रेष् विद्यमानानां जनानाम स्रक्षायै विकासायच अस्ति अत्रावसरे राजनाथसिंहेन श्री ऑस्टिनद्वारा स्वीयप्रथमविदेशयात्रायै भारतदेशं चयनं तस्य दविपक्षीय रक्षासम्बन्धान प्रति प्रगाढएवं स्थायि प्रतिबद्धतां प्रदर्शयति इत्यपि प्रतिपादितम उभो देशौ व्यापक वैश्विक रणनीतौ सम्पूर्णक्षमताया उपयोगायरक्षासम्बद्ध परस्पर संधिनां अधिकतमउपयोगाय च प्रतिबद्धौ स्तः इत्यपि रक्षामन्त्री राजनाथ उक्तवान तंत्रैव स्वीय वक्तव्ये श्री ऑस्टिन उक्तवान ायत ापरिवर्तनशीले अन्ताराष्ट्रिये परिवेशे भारतं अमेरिकादेशस्य महत्वपूर्ण सहयोगी वर्तते कोविड अपडव देशे साम्प्रतं यावत त्रिषष्टिसस्राधिक विंशति लक्षोत्तरचत्कोटिजनेभ्य सूच्यौषधानि प्रदत्तानि वर्तन्ते स्वास्थ्यपरिवार कल्याणंमंत्रालयान्सारि गतदिवसे त्रयोविंशति सहस्राधिक सप्तविंशति लक्षाधिका जना सूच्यौषधं प्राप्न्वन्त एवंच देशे महामारीत स्वस्थतामिति संवध्य एक द्वि दशमलवोत्तर षण्णवतिप्रतिशन्मिता संजाता

विभिन्नेष् राज्येष् कोविडनूतन प्रकरणै सह सक्रियप्रकरणेष् संवृद्धि सततं जायमाना वर्तते

भारत बायोटैकोपक्रमस्य कोविड सूच्यौषधाय अन्मतिप्रदात्रूपेण नेपाल तृतीयो देश वर्तते भारतेन जनवरीमासे एतस्य सुच्योषधस्य आपद्पयोगार्यम अन्मति प्रदत्ता आसीत तदनन्तरं मार्चमासारम्भे जिम्बाब्वे देशेन अपि एतस्य आपद्पयोगार्थम अन्मति प्रदत्ता नेपालस्य औषधि प्रशासन विभागेन संसूचितं यत भारतनिर्मिताय एतद सूच्यौषधाय दशानुकूलम अनुमति प्रदत्ता भारत बायोटैक प्रशासनेन प्रतिपादितं यतः चत्वारिंशतः देशै कोवैक्सीन सूच्यौषधाय रुचिप्रदर्शिता अपि च ब्राजील फिलीपिन्स थाईलैंड देशेष् एतस्य आपद्योगार्थम अन्मति प्रक्रियाधीना वर्तते वैक्सीन मैत्री सर्वकारस्य वैक्सीन मैत्री प्रक्रियान्तर्गतं लाओजनतांत्रिकगणराज्याय भारतनिर्मित सूच्योषधै सह विमाननेकम अद्य विएतिएनं सम्प्राप्तम हय सूच्यौषधानि सोलोमनदवीपाय सम्प्रेषितानि आसन विदेश मंत्रिणा एस जयशंकरेण संसदि ससूचितं यत भारतेन साम्प्रतं यावत द्विसप्ततिदेशभ्य एतानि सूच्यौषधानि सम्प्रेषितानि सन्ति पुद्दच्चशी नामांकन केन्द्रशासितप्रदेशे पृदच्चेर्या विधानसभा निर्वाचनोपक्रमे नामांकनप्रप्रणाय हय अन्तिमो दिवस आसीत अन्तिमे दिवसे समाहत्य पंचाशीत्युत्तरचत्ःशत प्रत्याशिन नामांकनपत्राणि पूरितवन्त त्रिंशत्निर्वाचनक्षेत्रेभ्य एप्रिलमास्य षट्दिनांके मतदानं भविष्यति एवञ्च दवितारिकायां परिणामा समुद्घोषयिष्यन्ते नामांकनपत्राणाम अद्य परीक्षणं भविष्यति दवाविंशतितारिकापर्यन्तं नामानि प्नरादायित् शक्यन्ते निर्वाचनविभागेन प्रतिपादितं यत सम्पूर्णा निर्वाचनप्रक्रिया मईमासे चत्र्दिनांक यावत निष्पन्ना भविष्यति करल नामांकन केरलप्रदेशे विधानसभानिर्वाचनक्रमे नामांकन प्रक्रिया सामाप्ता जाता तदनन्तरं राज्ये राजनीतिक गतिविधय द्रतगत्या प्रचलन्ति

नामांकन पत्राणां परीक्षणप्रक्रिया अद्य जायमाना वर्तते अत्र त्रीणि प्रम्खानि राजनीतिक दलानि सन्ति एलडीएफ यूडीएफ एनडीए दलानि च एतन्मध्ये यूडीएफ एलडीएफ दलाभ्यां गतविसे निर्वाचनीय घोषणापत्रं प्रसारितम भाजपादलेनापि शीघ्रमेव स्वीय घोषणापत्रं प्रसारयिष्यते

घटनेयं खेड़ तालुकाया लोटे इति स्थानके अभवत अस्माकं वार्ताहरेण सुचितं यत अग्निशमनविमान दलेन यन्त्रागारस्य अन्तः स्थितानां जननां सदय सुरक्षोचितकार्याणि विहितानि प्रधानमन्त्रिणा नरेन्द्र मोदिना घटनाम्पलक्ष्य शोकसन्तप्त परिवारान प्रति गभीरशोक प्रकटित प्रसन्नतादिवस अद्य अन्ताराष्ट्रिय प्रसन्नता दिवसो वर्तते अस्मिन अवसरे उपराष्ट्रपतिना एम वेंकैया नायड्रना जनासमाहता यत प्रसकारात्मक भावान्त्यक्त्वा प्रसन्नचिता भवेय् इति तेन भणितं यत सकारात्मक दृष्टि आध्यात्मिक विचारा स्वस्थजीवनशैली परस्परसहयोगभावना च प्रसन्नताया प्रम्खसोपानानि सन्ति उपराष्ट्रपतिना नीति निर्मातार निवेदिता यत ा तै प्रसन्नतामनोविज्ञानं महत्वं प्रददयात श्रीनायड़ना विद्यालयीय पाठ्यक्रमे अपि प्रसन्नता विषयस्य सम्मेलनाय निर्मातार निवेदिता एष विषय छात्रेष् आत्मश्विासं सकारात्मक दृष्टिकोणञ्च सम्त्पादयिष्यति नवरोज अद्य पारसी नववर्ष नवरोजइति अशेषे हि विश्वे सम्पूर्णेत्साहेन आमान्यते जोरेस्ट्रिय वार्षिक प्रपत्रानुसारेण नवरोजइति पारसी नववर्षरुपेण आमान्यते पारसी धर्मिणा जना दिनमिदं पर्वरूपेण समायोजयन्ति परसी नवरोज नववर्षदिवसम्पलक्ष्य प्रधानमन्त्रिणा नरेन्देमोदिना वर्धापनानि प्रदत्तनि

क्रिकट क्रीडा भारत इंग्लैण्डयोः मध्ये अन्वर्तमानायाः विंश्ति प्रतिविंशति क्षेप चक्रीयायाः क्रिकेट क्रीडा श्रंखलाया पञ्चमी निर्णायिकी च स्पर्धा अद्य अहमदाबादे नरेन्द्रमोदि क्रीडांगणे समायोजयिष्यते स्पर्धाया अस्या साक्षाद विवरण प्रसारणं आकाशवाण्या सार्ध षड़वादनत एफएम रेनबो अतिरिक्त प्रवाहिनिभि प्रसार्यते